आन्ध्रप्रदेशे ह्यो गोदावरी नद्यां द्रापन्नायाः भीषण नौ दर्घटनायाः अनन्तरं साम्प्रतमपि विल्प्नानां यात्रिणाम् अन्वेषणाय नौसखिस्य लघुविमान द्वयं तत्र सम्प्राप्तमस्ति कश्मीर विषयम् अधिकृत्य स्पष्ट वादिष् ब्रिटेन सांसदेष् अन्यतमः बॉब् ब्लक्सिम् अन्यतम्म कश्मीरः सर्वथा भारतस्य प्रभुत्वाधीनो भूभागः विद्यते अपि च पाकिस्तानं स्वाधिकृत कश्मीरं सद्यः संत्यजेत् म्यांमार अन्ताराष्ट्रिय बह्मिण्टन् स्पर्धा शृंखलायां हो यांगूने समायोजिते पुरुषकल वर्गीये निर्णायके द्वन्द्रे भारतस्य कौशल धरमामेरेण इण्डोनशिया देशीयं कारोनो कारोनं पराजित्य शुंखला स्वायत्तीकता

एतच्च वृत्त गतरात्रौ ह्वाइट हाउसेन पृष्टीकृतम्

आन्ध्रप्रदृष्ट नौदर्घटना आन्ध्रप्रदेशे ह्यो गोदावरी नद्यां द्रापन्नायाः भीषण नौ दर्घटनायाः अनन्तरं साम्प्रतमपि विलुप्तानां यात्रिणाम् अन्वेषणाय नौसस्थिस्य लघ्विमान द्रयं तत्र सम्प्राप्तमस्ति आन्ध्रस्य पर्वीय गोदावरी जनपदे देवीपत्तनं निकषा प्रायशः षष्टया यात्रिभिः संभृतं निजीय नौ विमानमेकं ह्यः सहसा विपरिवर्तितम्

राज्य मुख्यमन्त्रिणा वाईएस्जगन्मोहन रेड्डिना प्रत्येक मृतक परिवाराय दश लक्ष रूप्यकाणां साहाय्य राशि प्रदानं सद्यः समुद्घोषितम् राष्ट्रपतिः उपराष्ट्रपतिः प्रधानमन्त्री गृहमन्त्री च द्र्घटनामेनाभिलक्ष्य हार्दिक शोकं प्रकाशितवन्तः सन्ति